पश्चिमबंगाले प्रथम चरणार्थं द्वितीय चरणार्थं च नैर्वाचनिक प्रचारः पराकाष्ठां भजते भारत इंग्लैण्डयोर्मध्ये क्रीड्यमाणायाः एकदिवसीय क्रिकेट निकषस्पर्धायाः प्रथमे द्वन्द्वे इंग्लैण्डदेशं षट्षष्टि धावनांकैः पराजितवत्

भवन्त अपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सङ्कल्पं स्वीकुर्वन्त् मुख आवरकं सन्धारयन्तु सामाजिक द्रतां पालयन्तु पाणि पादं च यथा समयं प्रक्षालयन्तु

नवदिल्ल्यां अद्य केन्द्रीय मन्त्रिमण्डलस्य उपवेशनानन्तरं केन्द्रीय सुचना प्रसारण मन्त्री प्रकाशजावडेकरः वार्ताहरान् सम्बोधयता इदं समसूचितवान् सः प्रार्थितवान् यत् योग्यजनाः शीघ्रमेव पञ्जीकरणं क्र्वन्त् जावडेकरः प्रार्थयत् यत् टीकाकरणं कोविड नवदश इति वैश्विकमहामारीं उन्मूलयित् सुरक्षाकवचं अस्ति तेनोक्त यत् गतचतुर्विंशति होरावधौ द्वात्रिशत् लक्षजनाः सूच्यौषधस्य लाभ स्वीकृतवन्तः सः स्पष्टीकृतवान् यत् कोरोना सूच्यौषधं पर्याप्तमात्रायां अस्ति

प्रधानमन्त्री नरेन्द्रमोदी पूर्वीय मेदिनीपुर जनपदस्य कांठीनगरे भाजपादलाय प्रचार करिष्यति तत्रैव मुख्यमन्त्री ममता बनर्जी अपि बांकुराया प्रचार करिष्यति निर्वाचन आयोग पश्चिमबंगालराज्ये निर्वाचनसम्बन्धी समीक्षायै निर्वाचनायोगस्य सम्पूर्णदलं सिलीगुडीं प्राप्तः आयोगेन पश्चिमबंगाले आगामि विधानसभानिर्वाचनेष् कोरोना मानाङ्कस्य कठोरतया अनुपालनाय दिङ्निर्देशः प्रदत्तः अस्ति मुख्यनिर्वाचन आयुक्तस्य सुनीलअरोडा इत्यस्य नेतृत्वे केन्द्रीय निर्वाचनदल निर्वाचनसज्जता पश्यति निर्वाचनायोगेन मतदानकेन्द्रेष उचितदरी स्थापयित मुखनासिकाच्छादक हस्तप्रक्षालनद्रव्यस्य उपयोगः सनिश्चेत् निर्दिष्ट अस्ति

तत् पक्षतः जोनी वैस्टो सर्वाधिकं चतुर्नवति धावनाङ्कान् समर्जितवान् भारतीय कन्द्कक्षेपकर्तप् पी कृष्णा चतुर क्रीडकान् एस् ठाकुर त्रीन् अपि च भूवनेश्वरकुमारः द्वौ क्रीडकौ क्रीडातो बहिष्कृतवान् भारतीयपक्षतः शिखरधवनः विराटकोहली केएल राहलश्व धावनाङ्कानां अर्थशतकम् अधिगतवान्